असम प्रदेशे गतदिवसाद आरभ्य द्विशतं न्तनानि वैदेशिक न्यायाधिकरणानि सक्रियाणि संवृत्तानि सन्ति

दश दिवसीय श्रीगणपति महोत्सव गतदिवसे देशस्य विभिन्नेष् दिग्भागेष् सभक्ति सोल्लासं च समारब्ध

स तत्र सर्वप्रथमं व्लादिवोस्तोक नगर्या मायोज्ये पौरस्यार्थिक मञ्चस्य पञ्चमे शिखर सम्मेलने भागमावक्ष्यति एतदतिरिच्य यात्रायामेतस्यां तस्य भारत रशिया देशयो विशे वार्षिकोपवेशनेऽपि सन्निधानस्य कार्यक्रमो विद्यते गतसायं नवदिल्ल्यां यात्रोदेश्य सारं वार्ताहरेभ्यो विज्ञापयन् विदेश सचिव विजये गोखले स्पष्टमकरोत् यत् श्रीमोदिनो रशिया यात्राया मुख्यमुद्देश्यं तैल वाति गवेषण क्षेत्रे उभय पार्श्विक सम्बन्धस्य भूयोऽपि सुदृढीकरणं विद्यते

राष्ट्रिय राजधान्या अकबर मार्गे समवस्थितं गुजरातीय कला शिल्प समलंकृतं नूतनं भवनमिदं गुजरात प्रशासेन एक त्रिंशदृत्तर शत कोटि रूप्यकाणां व्ययेन विनिर्मापितमस्ति

क्रिकेट् भारतेन वेस्ट इण्डीजं विरुध्य द्वितीया अन्तिमा च क्रिकेट् निकष स्पर्धा सप्त पञ्चाशद्त्तर द्विशत धावनाकाना महताऽन्तरालेन विजिता

श्रीगणेशोत्सव दश दिवसीय श्रीगणपति महोत्सव गतदिवसे देशस्य विभिन्नेषु दिग्भागेषु सभक्ति सोल्लासं च समारब्ध एतदवसरे श्रद्धालुभि भगवतो गजाननस्य भव्यमूर्ति प्रतिष्ठाप्य विशिष्ट पूजन मनुष्ठितम्